सप्तषष्टितमानाम राष्ट्रिय चलचित्र पुरस्काराणां ह्य घोषणा जाता

भवन्तः अपि अस्माभि सह सुरक्षाया उपायत्रयस्य सङ्कल्प स्वीक्र्वन्तु मुखावरकं सन्धारयन्त सामाजिकदौर्यं परिपालयन्तु पाणिपाद च यथासमय प्रक्षालयन्त प्रधानमन्त्री नरेन्द्रमोदी प्रधानमन्त्री नरेन्द्र मोदी ह्य प्रावोचत् यत् जलसुरक्षा जलप्रबन्धनं च भविष्यत् प्रति अत्यन्तं महत्वपूर्णे स्तः ह्य प्रधानमन्त्री विश्वजलदिवसस्य अवसरे कैच द रेनइति नाम्न जलशक्ति अभियानस्य दृश्यश्रव्य संवाद प्रणात्या श्भारम्भम् अकरोत् अस्य अभियानस्य घोषः अस्ति जहां भी गिरे जब भी गिरे वर्षा जल एकत्र करें अर्थात् यदापि यत्रापि वा पतेत् वर्षाजलम् एकत्रितं कुर्वन्त् प्रधानमन्त्री प्रसन्नतां प्रकटयन् अवदत् यत् ग्रामीणजनाः वर्षाजलस्य संरक्षणाय प्रयत्नं कुर्वन्ति अन्यान् अपि शिक्षयन्ति श्री मोदी सबलं प्रत्यपादयत् यत् जलं धनस्य अपेक्षया बहुमूल्यम् अस्ति परन्तु जलसंरक्षणस्य सर्वत्र न्यूनता दृश्यते

प्रधानमन्त्री सबलं प्रोक्तवान् यत् यदि भारतं वर्षाजलस्य प्रबन्धने सम्यक्तया सफलं भवति तर्हि अनेन देशस्य भूजले निर्भरता अपि न्यूना भविष्यति प्रधानमन्त्रिणः उपस्थितौ जलशक्तिमन्त्रीमध्यप्रदेश उत्तरप्रदेशयोमुख्यमन्त्रिणौ च केन बेतवा सम्पर्कपरियोजना संबद्ध सहमतिपत्रम् अपि हस्ताक्षरैकृतवन्तः नदीनां योजनस्य राष्ट्रिय योजनान्तर्गतम् इयं प्रथमा परियोजना भविष्यति

एतदर्थं प्रत्याशिनां नामांकन प्रत्यावर्तनस्य ह्यः अन्तिम दिनांक आसीत् नामांकन प्रत्यावर्तनस्य अनन्तरम् एव तत्तद राज्येष् प्रत्याशिनां संख्या अंतिमं रूपं प्राप्स्यति

विभिन्नानां राजनैतिक दलानां वरिष्ठा नेतार मतदातृन् निजदलस्य समर्थने मतदानाय आक्रष्ट् प्रयतन्ते अपरत्र पश्चिम बंगाले पंचम चरणात्मक निर्वाचनम् आलक्ष्य नामांकन पत्र प्रपूरणस्य अद्य अन्तिम दिवस अस्ति

श्रेष्ठ हिन्दी चलचित्र पुरस्कार छिछोरे चलचित्राय प्रदत्त गुमनामीइति चलचित्रं श्रेष्ठ बंगाली चलचित्रत्वेन पुरस्कृतम्